समूहर्ष सेत्रत्या धरातलीयदशा निरीक्षिष्यतक प्रधानमन्त्री श्रीनरछिमोदी ब्रूतछिम् डोनाल्ड ट्रम्पस्य भारत यात्रया भारतामर्षिक्रियो सम्बन्धा भविष्यन्ति सुदृढा

अरविन्द क्जिरीवाल आम आदमी पार्टीति दलस्य विधायक दल नत्तिप्रचित

दलक्ष्मिन् जर्मनी कनाडा फ्रांस न्यूजीलैण्ड मैक्सिको इटली अफगानिस्तान ऑस्ट्रिया उज्बक्रिस्तान पौलैण्ड दश्तानां सदस्यै समती यूरोपीयसंघस्यप्रतिनिधयश्चापि समाविष्टा संति श्रीनगरं सम्प्राप्य दलक्ष्मिक्किउत्तर कश्मीरस्य बारामूला जनपदस्य निरीक्षण भ्रमणं करिष्यत बारामूलायां प्रतिनिधिमण्डल विभिन्न वाणिज्यिक संघै प्रशिक्षितय्वभि सरपञ्चै नागरिकसमूहै साकमपि सम्मद्विय्यता क्रेलमिद श्रीनगरउद्योगपतिभि व्यावसायिक प्रतिनिधिभिश्च सार्धमपि सम्भाषणं करष्यति प्रतिनिधिमण्डलमिद श्व जम्मू यात्रा करिष्यति दलत्तित्र उपराज्यपालं गिरीशचन्द्रमुर्मूवर्य समस्त प्राशासनिकाधिकारिभि साकमपि सम्भाषणं विधास्यतत मोदी द्रम्प यात्रा प्रधान मन्त्रिणा श्रीनरद्विमोदिना प्रोदितं यत् स प्रसन्नो वर्ततखितोहि अमध्कियो राष्ट्रपति डोनाल्ड ट्रम्प तत्पत्नी च मिलानिया ट्रम्पश्च फरवर्या चत्र्विश्यां पञ्चविंश्यां च भारत यात्रायाम् आयास्यत श्रीमोदिना ट्वीट् सन्दर्यक्रिलखि यत् भारतं तयो भव्यं स्वागताभिनन्दनं करिष्यति अमनोक्त यत् अमध्किय राष्ट्रपत आत्रा अतीव विशिष्टा वर्तत अनया यात्रया भारतस्य सम्बन्धा अमरिका दर्ज समम् अतोऽपि सुदृढा भविष्यन्ति

नवदिल्ल्यां सञ्चार माध्यमष्ठि सारं संक्षिपता सूचना प्रसारण मन्त्रिणा प्रकाश जावड़क्विद्व प्रतिपादितं यत् निर्णयोऽयं साक्षात्कर प्रहण विषय लम्बित विवादानां निदानार्थमपि अभिस्वीकृतोऽस्ति

अध मस्सिर्न क्रीडांगणक्रीडितायाम् अस्यां स्पर्धायां ऑस्ट्रविंय दलतपूर्व क्रीडता षट् पञ्चाशदत्तरैकशत धावनांकाना लक्ष्यं भारतस्य पुरत स्थापितम्